राष्ट्रपतिना श्रीरामनाथकोविन्देन जना अध्यर्थिता यत् समाजे शान्तिसंधारणस्य एकात्मकताविवर्धनस्य च अस्ति महती आवश्यकता विश्वस्वास्थ्यसंघटनेन चीनदेशे प्रसरित कोरोनाविषाणुरोगप्रख्यापित अतिभयंकर स्तरीय

प्रधानमन्त्री प्रयागराज प्रधानमन्त्री श्रीनरेन्द्रमोदी उत्तरप्रदेशे एकस्यां जनसभायामुक्तवान् यत् प्रशासनं जनानां जीवनसौकर्याय अनेकानि कार्याणि करोति श्रीमोदिना उक्तं यत् दिव्यांगजनेभ्य वरिष्ठजनेभ्य निर्धनेभ्य वंचितप्राणिभ्य किं बहना समाजस्य प्रत्येक वर्गेभ्यश्च कल्याणाय प्रशासनेन त्वरितप्रयासा विधीयन्ते श्रीमोदि प्रोक्तवान् यत् जनकल्याण तस्य प्रशासनस्य सर्वोच्च प्राथमिकता वरीवर्तते

तेनाग्रे उक्तं यत् पूर्वप्रशासनानि जनकत्याणय असंवेदनशीलानि आसन् प्रधानमन्त्रिणा भणितं यत् स्गम्यभारतयोजनान्तर्गतं सर्वेष् विमानपत्तनेष् सप्तशतं रेलयानेष् अन्येष् सार्वजनिकस्थलेष् अपि दिव्यांगजनेभ्य प्रशासनेन एता उपकरणसम्बन्धिस्विधा सौविध्येन सुलभायिता आसन्

श्रीकोविन्देन इदं झारखण्डराज्यस्य गुमलाजनपदे आयोजिते विकासभारत्या कार्यक्रमे प्रत्यपादि अवसरेऽस्मिन् राष्ट्रपतिना विकासभारत्यां जनजातीयसमुदायेन राष्ट्रपित्ः महात्मगांधिनः अनुयाय टाना इति भक्तैः सह वार्ता अपि कृता असौ प्रत्यपादयत् यत् सौवर्णस्वप्नदृष्टार महात्मगांधिन द्रष्ट्माकांक्षति स्म यत् कथं एतादृश्या विकासभारती इति संस्थया जनजातीयसम्दायस्य जीवने कृषि जलसंरक्षणम् ऊर्जस नवीकरणीय स्रोतसां संरक्षणार्थं स्थिरतां प्रदात् च स्वास्थ्यशिक्षाक्षेत्रेष् च महत्वपूर्णं परिवर्तनमाचरति दिल्ली पूर्वोत्तरदिल्ल्या मौजप्र बाबारपुर इति क्षेत्र निकषा अन्यस्थलेष् स्थिति सामान्यरीत्या प्रचलति जना स्वकीयेष् कार्योयोगक्षेत्रेष् गच्छन्ति शनै शनै अनेकानि आपणानि अपि उद्घाटितानि सन्ति वितगेभ्य अष्टचत्वारिशद होराभ्य न कापि अप्रिया घटना श्रृतिगोचरा जायते दिल्ल्यारक्षिप्रबलभटा अर्द्वसैनिकगुल्माश्च एतेष् हिंद्रघटनाप्रभावितक्षेत्रेष् सन्नद्धाः सन्ति शौर्यशीला धैर्यशीलाश्च भटा स्थानीयान् जनान् स्वकीयेष् दैनन्दिनोद्योगक्षेत्रेष् गमनाय अवबोधयन्ति दिल्ल्यारक्षिबलेन अमन कमेटी इति एकं शान्त्याचरणाय समिति निर्मिता वर्तते

संघटनस्य महानिदेशकेन डॉ टेड्रोसवर्येण उक्तं यत् संक्रमणापसारणाय औषधसूचीनाम् उत्पादनकार्यं जवीयस्या गत्या प्रचलति चीनदेशात् बहि दक्षिणकोरिया अमेरिका आदि देशेष् अपि आशंका विवर्धिता दरीदृश्यते